एतद्वर्षीयम् आरक्षण संशोधनविधेयकमपि लोकसभायाम् अभ्युपगमितम्

लोकसभा अमितशाह जम्मूकश्मीर गृहमन्त्रिणा अमितशाहेन जम्मू कश्मीरे जुलाई तृतीया त राष्ट्रपति शासनस्य अवधि अतोऽपि षण्मासं यावत् समेधनाथं लोकसभायाम् अद्य प्रस्ताव प्रस्तुत लोकसभया च प्रस्ताव अभ्युपगमित प्रस्तावमुपस्थापयता श्रीशाहेन ईरितं यत् राज्ये अस्य वर्षस्य अवसाने विधानसभा निर्वाचनानाम आयोजनार्थं सज्जता चलन्ति अनेन एतदपि भणितं यत् केन्द्रप्रशासनं राज्ये लोकतान्त्रिक रीत्या प्रचितं प्रशासनं रचयितं वचनबद्धम् अस्ति गृहमन्त्रिणा जम्म कश्मीरे विकासाय केन्द्र प्रशासन द्वारा प्रचालितानां कार्यक्रमाणामपि सुचना प्रदत्ता श्रीशाहेन सदने एतद्वर्षीयं जम्मू कश्मीर आरक्षण संशोधन विधेयकमपि विचार विमर्शाथं समृपस्थापितम् तदपि लोकसभया अभ्युगमितम प्रधानमन्त्री ओसका प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना द्वि दिवस व्यापि जी विंशति शिखरोपवेशनस्य प्रथमे दिवसे जापान देशस्य ओसाकायां विश्वस्य प्रमुख नेतृभि साधं द्वैपाक्षिकानि सम्भाषणोपवेशनानि समन्ष्टितानि अम्ना जापानस्य प्रधानमन्त्रिणा अमेरिकीय राष्ट्रपतिना च साकं त्रैपाक्षिकम्पवेशनमपि समाचरितम् शिखर सम्मेलनात् पृथक्तया प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अमेरिकीय राष्ट्रपतिना डोनाल्ड ट्रम्पेण समं द्वैपाक्षिकं सम्भाषणमपि समन्ष्टितम्

अद्य नव दिल्ल्यां एकस्मिन् कार्यक्रमे अनेन प्रोदितं यत् जलस्रोतसाम् अनारतं नैयून्यी भवनं मनवतायै बृहत् समाह्वानं वर्तते केन्द्रीय मन्त्रिणा भणितं यत् सम्प्रति समय समागत यत् स्वच्छ जलस्य लक्ष्यमधिगन्तम् अस्माभि स्वकीयं दायित्वं वोढव्यम् शेखावत वर्येण निगदितं यत् प्रशासनं नल द्वारा जनताया गृहे जल प्रापणस्य योजनां रचयति अमुनोक्तं यत् भारतं परिवर्तमानमस्ति अत सर्वेभ्य स्वच्छ पेय जलस्य उपपादनं नुनमेन सुनिश्चेयम वर्तते

यूगपदेव अन्तर्जाल सब्जालेष् घणोत्पादक भाषणै समृत्पन्न समाह्वानं समाधात्मपि सहयोगस्य अध्यर्थनास्ति विहिता भारतेन